उत्तर भारतीय क्षेत्रेष् शैत्य प्रकोप सम्प्रति परांकाष्ठायाम् रेलसेवा विमानसेवाश्च द्ष्प्रभाविता

देशदेशान्तराणां वास्तव्यै साधं प्रधानमन्त्रिण मनोगत प्रकाशनस्य मन की बात कार्यक्रमोऽयं आकाशवाण्या दरदर्शनस्य च सर्वाभि वाहिनीभि प्रसारयिष्यते यू ्विब इति आन्तर्जालिके प्रसारमाध्यमेऽपि कार्यक्रमस्य साक्षात्प्रसारणं भविता आकाशवाणी कार्यक्रमस्य अयं षष्टितमं संस्करणं भविता प्रधानमन्त्री जनान् कार्यक्रमाय अस्मै परामर्शं प्रेषयित्म् अब्रवीत् क्षेत्रीयास् भाषास् कार्यक्रमोऽयं रात्रौ अष्ठविदने श्रोत् शक्यते शीतलहरी दिल्ली समेतेष् प्रायश समस्तेष्वपि उत्तर भारतीय क्षेत्रेष् शैत्य प्रकोप सम्प्रति परां काष्ठां स्पृशति अद्य राष्ट्रिय राजधान्यां तापमान द्वि दशमलव चर्त्परिमितम दिल्ल्याम् कुज्झांकि कारणात् परिवहनानि प्रभावितानि जातानि दिल्ली वायुयान स्थात्रे अद्य प्रात गहन कुज्झीक्रिा कारणात् दृश्यता शून्या जाता यस्मात कारणात् रेलसेवा विमानसेवाश्च दृष्प्रभाविता एवमेव हिमाचले राजस्थाने अन्येष् च प्रदेशेष् नैकानि स्थलानि तीव्रतरं शैत्य प्रकोपं संमुखीकुर्वन्ति ऋतुविज्ञान विभाग व्यज्ञापयत् यदेषा शीत लहरी आगामिनि अहोरात्र य्गले अन्यान्यपि कतिचन क्षेत्राणि भूयसा परिव्याप्त्मर्हति

अद्य प्रात सोमालियायां एकस्मिन् ट्रक विस्फोट त्रिसप्ततिजना मृता मेयर महमूद मोहम्मेदेनोक्तं यत् मृतेष् जनेष अधिकांश विश्वविद्यालयस्य छात्रा सन्ति

प्रगति प्रपत्रे प्रोक्तं यत् वैश्विकी अर्थव्यवस्था अनिश्चित दिशा प्रयाति

मुष्टामुष्टि मुध्य मुष्टिस्पर्धायाम् षड्वारस्य विश्वश्रेष्ठा एमसीमैरीकॉम एकपञ्चाशत् किलोपरिमितभारवर्गे निकहत जरीनं पराजित्य आगामिनि वर्षे चीने ओलम्पिक क्वालिफर प्रतिस्पर्धायै स्वस्य स्थानं निश्चितं कृतवती अस्यां प्रतिस्पर्धायां मैरीकॉमेन प्रतिद्वन्दिनी निकहत जरीन नव एक अड्कपुरस्तात् पराजिता